सांप्रतम् महामार्याः स्वस्थतामिति प्रवर्ध्य त्रयाशीति दशमलव शून्य चत्वारि मिता पंजीकृता कोविडसन्देश प्रिय श्रोतार समस्तेऽपि देशे पुनः समेधमानेन विकराल कोरोना संक्रमणेन जनसामान्याः भयाकुलाः दरीदृश्यन्ते अतः भवन्तः प्रार्थ्यन्ते यत् सूच्यौषधम् अवश्यमेव स्वीकुर्वन्तु असावधानतां नैव आचरन्तु

मुखावरकं सन्धारयन्तु दैहिक दौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

अवधेस्यापदं वर्तते यत् ऑक्सिकेयर एसपीओटूइति आधारिता प्रणाली वर्तते या रोगिणाम् प्रदीयमानं प्राणवायुम् नियंत्रितम् करोति एवञ्च इयं प्रणाली जनान् हाइपोक्सिया स्थितौ गमनात् निवारयति हाइपोक्सियायाः स्थितिः रोगिणाम् कृते मृत्योः सादृशःअस्ति अस्याः प्रणाल्याः विकासः डीआरडीओइत्यस्य बेंगलुरुस्थ रक्षा जैव अभियांत्रिकी एवं इलेक्ट्रोमेडिकल प्रयोगशालायाम् अभवत् स्वदेशे विकसिता इयं प्रणाली व्यावहारिकी अत्यधिक उपयोगिनी चास्ति या कोविड रोगिणाम् उपचारक्रियायाम् प्रभाविरूपेण कार्यम् करिष्यति

नवदेहल्याम् मन्त्रिलमण्डल उपवेशनान्तरम् सूचनाप्रसारणमंत्री प्रकाशजावड़ेकरः प्रोक्तवान् यत् इयं योजना ईंधनस्य आयाते निर्भरतां अल्पम् करिष्यति अपि च बैटरीसङ्ग्रहण उपकरणस्य स्वदेश उत्पादनम् संवर्धयिष्यति

मन्त्रालयेन विज्ञापित यत् विभिन्नेभ्य विदेशेभ्य समागत सहायतां समुचितरूपेण वितरणं कृत्वा सुव्यवस्थित सर्वकारीय तन्त्रस्य माध्यमेन सहयोगं कुर्वन्ति

एतेषु राज्येषु उत्तराखण्ड हरियाणा पंजाब बिहार झारखंड ओडिशा तेलंगाना जम्मूकाश्मीरा सम्मिलिता आसन् डॉक्टर हर्षवर्धनेन प्रोक्तमिदं यत् सर्वकार देशे सूच्यौषध उत्पादनाय द्रतगत्या कार्यम् निष्पादयति